श्व समायोक्ष्यमाणस्य एकसप्तति तमस्य गणतन्त्र दिवसस्य भव्यायोजनार्थं सर्वा सज्जता पूर्णता गता भारत ब्राजीलयोर्मिथ सम्बन्धं सुदृढीकरण पराणि पञ्चदश सन्धिपत्राणि हस्ताक्षरै प्रमाणितानि

आकाशवाण्या द्रदर्शनस्य च सर्वाभि वाहिनीभि सायं सप्तवादनात् कार्यक्रमोऽयम् प्रसारयिष्यते पश्चात् अस्य आंग्लानुवादोऽपि प्रस्तोष्यते तदनन्तरं राष्ट्रपते संबोधनस्य अनदितरूपं आकाशवाण्या क्षेत्रीय भाषास अपि तत्रत्केन्द्रेभ्य रात्रौ सार्धनव वादनात् प्रसारयिष्यते

अत्र वीरतायै प्रदीयमानेन राष्ट्रपति अग्नि शमन सेवा पदकेन त्रयोदश कार्मिका पुरस्कृतवन्त वीरता अग्नि शमन सेवा पदकम् नवविंशति कार्मिकेभ्य अत्र क्षेत्रे प्रतिष्ठित सेवा प्रदानाय राष्ट्रपति अग्नि शमन सेवा पदकम् द्रादश कार्मिकेभ्य अथ च प्रशंसनीय योगदानाथं पञ्चाशत् कार्मिकेभ्य अग्नि शमन सेवा पदकम् प्रदत्तम् एतदतिरिच्य नवचत्वारिशत् कार्मिकेभ्य सुरक्षा पदकानि नागरिक पदकानि चापि प्रदत्तानि राष्ट्रपति राष्ट्रपति रामनाथ कोविन्द न्यगादीत् यत् भारतस्य नैर्वाचनिकी प्रक्रिया वैश्विक समुदाये देशस्य गौरवं विवर्धते राष्ट्रपतिनोक्त यत् लोकतन्त्रस्य प्रणालीयम् अत्र सर्वेषामपि सहभागित्वं समाश्वासयति येन देशस्य शक्ति अतोऽपि सबलायते राष्ट्रपति अद्य नवदिल्यां दशमे राष्ट्रिय मतदातृ दिवसोपलक्ष्ये समायोजिते एकस्मिन् कार्यक्रमे सम्भाषते स्म अत्रावसरे लोकतंत्र भूयोऽपि सुदृढयित्ं निर्वाचन सन्दर्भे जनजागरणार्थं निर्वाचनायोगेन कृता भूरि प्रयासा राष्ट्रपतिना प्रशंसिता गणतन्त्रदिवस श्व समायोक्ष्यमाणस्य एकसप्तति तमस्य गणतन्त्र दिवसस्य भव्यायोजनार्थं सर्वा सज्जता पूर्णतां गता प्रमुख कार्यक्रम राष्ट्रिय राजधान्या राजपथे श्व आयोजयिष्यते यत्र राष्ट्रपति रामनाथ कोविन्दः सैन्य सम्मानं स्वीकरिष्यति

आकाशवाण्याः मासिकस्य श्रव्य कार्यक्रमस्य इदम् एकषष्टितमं संस्करणं भविष्यति सामान्यतः कार्यक्रमोऽयं प्रातः एकादश वादने प्रसार्यते परञ्च अस्मिन् मासे अस्य प्रसारण सायंकाले षड् वादने भविष्यति श्री सन्देश माध्यमेन श्रीमता मोदिना विज्ञापितं यत् वर्षस्य प्रथम मन की बात कार्यक्रम विशिष्टे दिने गणतन्त्र दिवसे भवति भारत ब्राजील भारत ब्राजीलयोर्मिथ सम्बन्धं सुदृढीकरण पराणि पञ्चदश सन्धिपत्राणि हस्ताक्षरै प्रमाणितानि एतानि क्षेत्राणि व्यापार निवेश तैल वातीन्धन संगाणिक सुरक्षा सूचनाप्रविध्यादीनि सन्ति